विपक्षिभि कृतकोलाहलेन राज्यसभाया गतिविधय आदिनाय स्थगिता कोलाहलस्य च कारणम् आसीत् ईंधनमूल्यवृद्धि अन्ताराष्ट्रियमहिलादिवसाय राष्ट्रपति उपराष्ट्रपति प्रधानमन्त्र्यादिभि शुभाशया वितरिता प्रधानमन्त्रिणा जना निवेदिता महिलोद्योगीनाम् उत्साहवर्धनाय उक्तं च नैकानां वस्तूनां क्रयणे कानिचन वस्तूनि महिलोद्योगिभ्य क्रेतव्यमिति हॉकी क्रीडायां भारतदेश ब्रिटेनदेशेन साकं चत्र्थे अन्तिमे च संघर्षे अद्यैव संघ्यायां सम्म्खी भविष्यति

प्रधानमन्त्रिण आध्यक्ष्ये गठितायां समितौ एकोनष्ट्यधिकद्विशत सदस्या सन्ति उपवेशनमिदम् आभासीय माध्यमेन भविता

राज्यसभा स्थगन् राज्यसभाया कार्य अद्य खाद्यनिर्माणप्रयोजनीयस्य ईंधनस्य मूल्येष् वृद्धिम् उपलक्ष्य कांप्रेस सांसदना कृतविरोधत्वात् दिवसपर्यन्ताय स्थगितं अभवत् इत प्राक् आयव्ययप्रपत्रस्य द्वितीय चरणस्य प्रथमे दिने श्रीखड़गेवर्येण भणितं यत् देशे ईधनस्य वृद्धि कारणेन जना दुखिता सन्ति तेनोक्तं यत् पेट्रोल डीजल इत्यनयो मूल्य संवर्धनेनापि जना चिन्तिता सन्ति सभाया चर्चायां मध्ये एव कांप्रेसदलस्य नेतार कोलाहलं कृतवन्त यस्मात् सभापतिना श्रीएम वेंकैयानायड्रना सदस्याआसनासीना भवेयू इति आप्रहं कृतम् अन्ते च अशान्तित्वात् एकदिवसाय सभा स्थागिता जाता महिला दिवस अद्य अन्ताराष्ट्रियमहिलादिवस वर्तते अवसरेऽस्मिन् सर्वाभ्य मातृशक्तिभ्य दिवसस्यास्य नैका श्भकामना वर्धापनानि च आकाशवाणीपक्षत

दिवसेऽस्मिन् महिलानां सांस्कृतिक आर्थिक राजनीतिक सामाजिकादि उपलब्धीनामुपरि सम्मानधायकानि कार्यक्रमाणि आयोज्यन्ते दिवसोऽयं जीवनस्य प्रत्येकस्मिन् क्षेत्रे महिलाभि निर्वोढिताया असामान्य भूमिकाया रेखांकनायै परिपाल्यते

अस्मत् वार्ताहरा असूचयत् यत् महिलाभि देशोऽयं गौरवान्वित याभि जलचलनभस् स्वीयादम्यक्षमतानां संसिद्धि कृता

अन्ते च तेन निगदितं यत् अस्मत्प्रशासनम् सम्मानितमनुभवति महिलासशक्तिकरणक्षेत्रे कार्यं कृत्वेति राज्यसभाध्यक्षेण एमवेंकैया नायड् वर्येणापि महिलानां भूमिकाया नैकेष् क्षेत्रेष् कृतकार्याणां कृते प्रशंसा विहिता देशस्य अन्यै नेतृभिरपि दिवसस्यास्य वर्धापनानि सादरं वितरितानि

अन्ताराष्ट्रिय महिला दिवसे श्रीमोदिना जनै महिलानां उद्यमितां संवर्धनाय आप्रह कृत अप्रे तेनोक्तं यत् महिलानां उद्यमिता सृजनात्मकता च प्रशंसनीयास्ति भारतीय संस्कृति प्रति आभारस्य गौरवस्य च अनुभवेन साधं तासां उत्पादनानि जनैः क्रेतव्यानि एकस्मिन् ट्वीटालेख्ये असौ तमिलनाडो टोडा जनजाति कलाकाराणाम् प्रशंसां कृतवान् प्रधामन्त्री अकथयत् यत् देशस्य नारीशक्ते स्थानीय शिल्पकलायां महती भूमिका अस्ति या प्रशंसनीयापि वर्तते महिलानां विभिन्नक्षेत्रेष् योगदानं अविस्मरणीयं वर्तते

तत्रैव समग्र देशे स्वस्थतामिति षण्णवति दशमलव नव एकमिता पंजीकृता अपि च चतुर्दशसहस्रं जना स्वस्थीभूय गृहं प्रत्यागता राज्यसभा रक्षा रक्षा एवं अन्तरिक्षक्षेत्रे अस्य वर्षस्य जनवरीमासपर्यन्तं एकनवत्यधिकैकशतंकोटितोप्यधिक चतुस्सहस्वं रूप्यकाणां प्रत्यक्ष वैदेशिक निवेशं जातम् वार्तेयम् अद्य राज्यसभायां रक्षा राज्यमन्त्रिणा श्रीपदयेसोनाईकवर्येण कथितम्

मासस्यास्य सप्तविंशति दिनांके निर्वाचनमिदं भवितेति निर्वाचनायोग संसूचितवान् निर्वाचनेऽस्मिन् सप्तचत्वारिशत् स्थलेभ्य मतदानं भविष्यति